मन की बात प्रधानमंत्री नरेन्द्रमोदी जलसंरक्षणाय जनान्दोलनं समारब्ध् जनान् आहवयत् अम्ना अजलबिन्द्रनां संरक्षणाय जना अध्यर्थिता प्रधानमन्त्रित्वेन दवितीय कार्यकालस्य प्रथमोऽयं मन की बात कार्यक्रमो विद्यते जलसंरक्षणाय श्रीमोदिना पृथक् पृथक क्षेत्राणां प्रथितजना निवेदिता यत् ते जनान्दोलनस्य नेतृत्वं क्य् प्रधानमन्त्रिणा ग्रामप्रधानेभ्य सरपञ्चेभ्यश्च पत्राणि विलिख्य जलसंरक्षणाय चर्चा कर्तव्या इति विचार प्रकटित श्रीमोदिना निगदितं यत् समग्रस्वास्थं प्रति जागरणेन जगति योगस्य महिमा योगदिवसस्य महत्वं च संवर्धितम् लोकतन्त्रमहोत्सवस्य साफल्याय च अर्द्धसैन्यबलानि स्रक्षाकर्मिण मतदातारश्च अम्ना श्लाधिता

जावडेकर केन्द्रीयसूचनाप्रसारणमन्त्री प्रकाशजावड़ेकर प्रावोचत् यत् मन की बात इति कार्यक्रम जगति अनुपम कार्यक्रम यस्मिन प्रधानमन्त्रिणा स्वयमेव जनै सह साक्षात् सम्भाषणं क्रियते अद्य पूणे नगरे मन की बात इति कार्यक्रमस्य श्रवणानन्तरं अम्नोक्तं यत् निश्चितरूपेण प्रधानमन्त्रिण जलसंरक्षणाय निवेदनं स्वच्छताभियानमिव जनान्दोलनं भविष्यति

विदेशमन्त्रालयस्य स्रोतोभि सूचितं यत् चर्चायै न्तनदिनांकनिर्धारणं भारतस्य प्रतिबद्धता प्रकटयति दिल्ली ग्रीष्मावकाश राजधान्यां नवदिल्ल्यां तापमानवृद्धिं निध्याय प्रशासनेन अष्टमी कक्षां यावत् सप्ताहावधिं यावत् प्राशासनिक प्रशासनेतर विदयालयेष् च ग्रीष्मावकाश समेधित एकस्मिन् ट्वीट सन्देशे दिल्ल्या उपम्ख्यमन्त्री मनीषसिसोदिया प्रावोचत् यत् अन्यकक्षास् यथावत् शिक्षणं भविष्यति

अमरनाथ यात्रा वार्षिकामरनाथयात्रायै द्विशताधिक द्विसहस्र श्रद्धालूनां प्रथमं दलम् अद्य भगवती नगरशिविराय प्रस्थितम् प्रशासनेन श्रद्धालूना सुखदयात्रायै सुदृढ़ा सुरक्षा व्यवस्था कृतास्ति यात्रार्थं त्रिनवति वाहनेष् श्रद्धालूनां प्रथमं दलं निर्गतम् संस्कृतवार्ता प्रसारणम् आकाशवाण्या संस्कृतवार्ता प्रसारणस्य अद्य पञ्चचत्वारिंशत् वर्षपूर्ति वर्तते गतशताब्दीस्य चत्स्सप्ततितमे वर्षे आकाशवाणीत संस्कृतवार्ता प्रसारणं प्रारब्धमासीत् साम्प्रमपि जना संस्कृतवार्ता प्रसारणं सोल्लासं श्रृण्वन्ति